कोरोना विषाण् संक्रमणमृद्रिश्य मानव संसाधन विकासमन्त्रालयेन शिक्षण संस्थानानि तत् परीक्षा मार्च मासस्य एकित्रंश दिनाङ्कं यावत् स्थगयित् विनिर्दिष्टानि अभिनवेन परिवहनाधिनियम प्रवर्तनेन देशे मार्ग दुर्घटनासु प्रतिशतं दशमितं नैयून्यम् समागतम् प्रधानमन्त्री प्रधानमंत्री नोन्द्रमोदी अद्य सायं अष्ट वादने राष्ट्रं सम्बोधयिष्यति अत्रान्तरे असौ कोरोना विषाणो नियन्त्रणाय देशे विहितान् उपायान् विशदीकरिष्यति सन्दर्भमिमम् आलक्ष्य प्रधानमंत्रिणा गतसायं उच्चस्तरीयम् उपवेशनमपि समाचरितम् आसीत् अत्र संक्रमणोन्मूलनाय विधीयमानानां प्रबन्धानां अपि च भविष्यतिकाले विषाण् पीडितानां चिकित्सकीयं परीक्षण सौविध्यं अतोऽपि सुलभायित् परिचर्चा समन्ष्ठिता अत्रान्तरे रूजा पीडितानां उपचारे संलग्ना चिकित्सका कर्मिणश्च प्रधानमन्त्रिणा हृदयेन अभिनन्दिता

हर्षावहोड़यं सन्देश एतेषु न कस्यापि परीक्षण परिणाम सकारात्मक समागत घ्येयमस्ति यत् परिषदा अशेषदेशस्य प्राय सार्थ द्वादश सहस्र जनानां कोरोना संक्रमण परीक्षणं कृतमासीत

एवं देशे अध्नावधि रूजा पीडितानां संख्या आहत्य अष्ट षष्ट्यधिक शतं अभूत् एतेष् पंचविंशति प्रकरणानि वैदेशिकानां सन्ति एतेष् चतुर्दश पीडिता स्वास्थ्य लाभं प्राप्य चिकित्सालयात् विमुक्ता एतदतिरिच्य साम्प्रतं यावत् देशे प्राय चत्र्दश लक्षं विमान यात्रिणां चिकित्सकीयं परीक्षणं विहितम् लोकसभा अभिनवेन परिवहनाधिनियम प्रवर्तनेन देशे मार्ग दुर्घटनासू प्रतिशतं दशमितं नैयून्यम् समागतम् विषयेऽस्मिन् पथ परिवहन मन्त्री नितिन गडकरी लोकसभायाम् अद्य अभिभाषते स्म अमुना सूचितं यत् ऐषम परिवहनाधिनियम प्रवर्तनानन्तरं गुजराते मार्गदर्घटनायां मृतकानां संख्या प्रतिशतं चतृर्दशमिता अपि च उत्तरप्रदेशे मृतकानां संख्या प्रतिशतं त्रयोदशमिता अधिगता मानव संसाधन विकासमन्त्रालयनिर्देश मानव संसाधन विकासमन्त्रालयेन विश्वविद्यालयानुदानायोग अखिल भारतीय प्राविधिक शिक्षा परिषद राष्ट्रिय मुक्त विद्यालय शिक्षा संस्थानम केन्द्रीय माध्यमिक शिक्षा परिषद तदधीनानि च सर्वाणि शिक्षण संस्थानानि कोरोना विषाण् संक्रमणमृद्रिय सर्वा अपि परीक्षा मार्च मासस्य एकित्रंश दिनाङ्कं यावत् स्थगयित् विनिर्दिष्टानि मानव संसाधन विकास मंत्री रमेश पोखरियाल निशंक छात्रान् शिक्षकान् अभिभावकान् च न्यवेदयत् यत् नुतन परीक्षा तिथि तालिका संदर्भे मा चिन्तयन्तु इति रेलयान स्थगनम् रेलमन्त्रालयेन देशे प्रवर्धमानात् कोरोना विषाणो प्रकोपकारणात् चतुरशीति रेलयानानि पुनरद्य मार्च मासस्य एकत्रिशं दिनं यावत् स्थगितानि

यात्रिण वैयक्तिकरूपेण सन्दर्भेंडस्मिन् संसूिचता यात्रिणाम् कृते आरक्षण निरस्तीकरणस्य शुल्कमुक्त व्यवस्था प्रकल्पितास्ति इत्यपि व्यज्ञापयत् रेलमन्त्रालय